ट्रम्प वक्तव्यम अमेरिकीय राष्ट्रपति डोनाल्ड ट्रम्प स्वीयां भारत यात्रां उददिश्य उत्साहं प्राकाशयत अम्ना प्रधानमन्त्रिण नरेन्द्रमोदिन कार्यजातानि प्रशंसितानि

ध्येयमस्ति यत ा श्री ट्रम्प फरवरी चत्र्विशे दिनांके भारत यात्रार्थं समागच्छति प्रधानमन्त्री प्रधानमन्त्री नरेन्द्रमोदी अहमबादे सरदार पटेल अन्तार्राष्ट्रिय विमानपत्तन स्थले अमेरिका राष्ट्रपते स्वागतं समाचरिष्यति यत्र श्रीट्रम्प सैन्य सम्मान पूर्वकं सभाजयिष्यते तत नेतृद्वयं साबरमती आश्रमं नयनगोचरी करिष्यतः

अयोध्यायां राम मंदिर निर्माणस्य कार्यजातं प्रप्रयित् केन्द्रप्रशासनेन न्यासोऽयं निर्मितोऽस्ति अत्र उपवेशने मन्दिर निर्माणस्य दिनांको निर्धारयिष्यते इत्याकल्यते पंचदश सदस्यात्मके अस्मिन ान्यासे अन्यान ागणमान्यान ासमेत्य धर्मावलम्बिनोऽपि समवेतास्सन्ति शाहीनबाग शाहीनबागप्रदर्शनप्रकरणं समाधात् शीर्षन्यायालयेनाद्य वार्ताकार दवयं निय्क्तम एतयोर्कार्य शाहीन बागे नागरिकता संशोधन विधिं विरूद्धय प्रवर्तितस्य प्रदर्शनस्य समाधानं समापनं चास्ति